गृहमन्त्रिणा अमित शाहेन पुनरुदीरितं यत् जम्मू कश्मीरे स्थिति पूर्णत सामान्या अस्ति झारखण्डे विधानसभा निर्वाचनानां तृतीय चरणार्थं प्रचाराभियानानि अद्य सायं सम्पन्नतां गतानि नेपाले त्रयोदश दक्षिणैशिया क्रीडा स्पर्धानाम् अन्तिमे दिवसे भारतं द्वादशधिक त्रिशत पदकानि सम्प्राप्य शीर्षस्थानम् अलंकुरुत राष्ट्रपति राष्ट्रपति रामनाथ कोविन्द अवादीत् यत् व्यावहारिक दृशा प्रभाविरूपेण मानवाधिकारणां सुदृढीकरणं सम्पूर्ण समाजस्य सामूहिकोत्तरदायित्त्वम् अस्ति मानवाधिकार दिवसम् उपलक्ष्य नवदिल्ल्याम् आयोजिते एकस्मिन् कार्यक्रमे श्री कोविन्देन उक्तं यत् विगतदिवसेष् देशस्य अधिकतर भागेभ्य महिलापराध घ ित्रानां सूचना सम्प्राप्ता

राष्ट्रपतिना उक्तं यत् जनै स्व कर्तव्यानाम् अवहेलना न कदापि करणीया तेनोक्तं यत् महात्मा गांधी अधिकारान् कर्त्तव्यांश्च सम दृष्यिा अवलोकयति स्म अमित शाह गृहमन्त्रिणा अमित शाहेन प्नरुदीरितं यत् जम्मू कश्मीरे स्थिति पूर्णत सामान्या अस्ति अपि च स्थानीय शासनेन यथाकालं नेतार विमोचयिष्यन्ते तेनोक्तं यत नेतुणां कारावास स्थापन प्रसंगे केन्द्र प्रशासनस्य कश्चन हस्तक्षेप विद्यते

गृहमन्त्री कांप्रेस नेत् अधीर रंजन चौधरिण प्रश्नम् उत्तरन् अवादीत् यत् मुख्यविपक्षि दलेन उक्तमासीत् यत् सप्तत्यधिक त्रिशत तम्या सांवैधानिक धाराया अपाकरणेन विनाशलीला भविष्यति परञ्च एवं न किमपि अभूत् झारखण्डम् निर्वाचनम् झारखण्डे विधानसभा निर्वाचनानां तृतीय चरणार्थं प्रचाराभियानानि अद्य सायं सम्पन्नतां गतानि चरणेऽस्मिन् रांची हजारीबाग गिरीडीह बोकारो चतरा रामगढ सरायकेला खरसावां कोडरमाख्यानाम् अप्ताजनपदानां सप्तदशसू निर्वाचन क्षेत्रेष् आगामिनि ग्रुवासरे मतदानानि भविष्यन्ति प्रचाराभियानस्य अन्तिमे दिने सर्वेषामपि राजनैतिक दलानां नेतृभि जनान् स्व पक्षे आक्रष् सर्वात्मना प्रयतितम् चरणेऽस्मिन् द्वात्रिंशन्महिला समेत्य नवाधिक त्रिशत प्रत्याशिनां राजनैतिक भविष्य निर्धारणं भविष्यति

ततः पूर्वं विधेयकमधिकृत्य सांसदैः चिरं चर्चितं मत विभाजनं च संमुखीकृतम्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

सी त्रिंशदधिकैक शतम् इत्याख्येऽस्मिन् विमाने आहत्य अप्टात्रिंशज्जना आरूढा आसन्

दक्षिणैशियाक्रीडा नेपाले त्रयोदश दक्षिणैशिया क्रीडा स्पर्धानाम् अन्तिमे दिवसेऽद्य भारतेन दश सुवर्ण पदकानि द्वे रजतपदके एकं च कांस्य पदकम् अर्जितानि इत्थं विजयाङ्क तालिकायां भारतं द्वादशधिक त्रिशत पदकानि सम्प्राप्य शीर्षस्थानम् अलंकुरते भारतेन एतास् स्पर्धासु आहत्य चतुस्सप्तत्यधिकैक शतं सुवर्णपदकानि त्रनवति राजतानि पञ्चचत्वारिशच्च कांस्यानि पदकानि अधिगतानि क्रिकेट् भारत वेस् ब्रिंडीजयोर्मध्ये अनुवर्तमानाया स्पर्धा त्रयात्मिकाया विंशतिं प्रतिविंशत्यन्ताराष्ट्रिय क्रिकेट् क्रीडामालिकाया तृतीया अन्तिमा च स्पर्धा श्व मुम्बय्यां वानखेडे क्रीडागणे समायोजयिष्यते